प्रोक्तं च यत् पर्यावरणं पशुसम्पदा च भारतस्य आर्थिकचिन्तने महत्त्वपूर्णे स्त

अद्य मथ्रायां विविध कार्यक्रमाणां श्भारम्भावसरे श्रीमोदिना निगिदतं यत् पर्यावरणं पश्सम्पदा च भारतीय आर्थिक चिन्तन परम्पराया महत्त्वपूर्णपक्षे स्त प्रधानमन्त्रिणा प्रोक्त यत् पश्पालने मत्स्यपालने मक्षिकापालने च विहितेन निवेशेन कृषकाणाम आयः समेधते प्रधानमन्त्रिणा जना अध्यर्थिता यत् ऑक्टूबर मासस्य द्वितीयदिनात् निजगृहेष् कार्यालयेष् अन्यक्षेत्रेष् च सकृत्प्रयुक्ता करदविमोक्त् प्रयासान् आचरेयु उपभोक्तसुरक्षा विधि केन्द्रीयखाद्य प्रसंस्करणोपभोक्त प्रकरणानां मन्त्री रामविलासपासवान प्रावोचत् यत् उपभोक्तूस्रक्षाविधे प्रवर्तनम् ऐषमो दिसम्बरमासस्य त्रिंशत् दिनात् भविष्यति बिहारस्य पटनायां वार्ताहरान् सम्बोधयन् रामविलासपासवान प्रावोचत् यत् एकं राष्ट्रम् एकं प्रपत्रम इत्यस्य प्रवर्तनं चतुर्दशराज्येष सञ्जातम अन्येष राज्येष्वपि अस्य प्रवर्तनं शीघ्रं भविष्यति प्रशासनं शतं दिनानि केन्द्रीय विधिमन्त्री रविशंकर प्रसाद प्रावोचत् यत् मोदि प्रशासनस्य द्वितीय कार्यकाला वधौ शतदिवसेष् जम्मूकश्मीरात् विशेषविधे निराकरणम् अथ च त्रितलाकविधे समासाधनम् प्रम्खकार्ये स्त असौ अहमदाबादे वार्ताहरसम्मेलनं सम्बोधयति स्म अम्नोक्तं यत् सामाजिक सुरक्षा स्वास्थ्यक्षेत्रे च मोदिप्रशासनेन श्लाघनीयं कार्य कृतम् देशस्य आर्थिक स्थिति किञ्चित् वैपरित्यं सम्मुखी करुते तथापि मूलार्थिकस्रोतांसि समुचितानि विद्यन्ते प्रधानमन्त्री मुख्य सचिव प्रधानमन्त्रिणो नरेन्द्रमोदिन मुख्यसचिवत्वेन नियुक्त पीके मिश्र मन्त्रिमण्डलस्य नियुक्ति समित्या निर्णयोऽयं स्वीकृत इत पूर्व डॉ पीके मिश्र प्रधानमन्त्रिणो अतिरिक्त मुख्य सचिवत्वेन कार्यभारं सम्भालयति स्म अमुना नृपेन्द्रमिश्रस्य स्थानम् उररीकृतम् अवधेयमस्ति यत् नृपेन्द्रमिश्रेण विगत मासे स्वपदात् त्यागपत्रं प्रदत्तमासीत् प्रशासनम् नवाचार मानव संसाधनविकासमन्त्री रमेशपोखरियालनिशंको ब्र्ते यत् नवाचार प्रविधि प्रयोगेणा अनुसन्धानेन च समस्या निवारणं कुर्वन्तु युवान अत्र विषये प्रधानमन्त्रिण नरेन्द्रमोदिन विचारं समुद्धरन् असौ देशोत्कर्षाय नवाचारोपयोगं सबलं प्रत्यपादयत् असौ अद्य नवदिल्यां मन्त्रालयानां नवाचार प्रकोष्ठेन समन्ष्ठितम् कार्यक्रमम् सम्बोधयति स्म कश्मीरआतङ्कवादी व्यापादित जम्मू कश्मीरस्य सोपोरे क्षेत्रे फलव्यापारिणो गृहम्पेत्य कृताक्रमणे संलिप्त लश्कर ए तैयबा गुल्मस्य आतङ्कवादी सुरक्षाबलै व्यापादित आसिफ मकबूलातंकवादिनो ग्प्तसूचनाधारेण सुरक्षाबलै तक्षेत्र नियन्त्रणाधीनं कृतम् उपत्यकाया बारामुला जनपदस्थे सोपोर क्षेत्रे संघर्षावधौ सुरक्षाबलै असौ मारित प्रधानमन्त्री आतङ्कवाद प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रोदीरितं यत् आतङ्कवाद सम्प्रति वैश्विकसमस्या संवृत्त अस्य मूलम्रोतांसि अस्माकं प्रतिवेशि राष्ट्रे प्रसरितानि सन्ति श्रीमोदिनोक्तं यत् भारतं सर्वविधसमस्या समाधात् समर्थं विद्यते मथ्रायां स्वच्छता हि सेवा कार्यक्रमस्य उद्घाटनानन्तरं श्रीमोदिना प्रोक्त यत् शतवर्षपूर्वम् स्वामिविवेकानन्देन अमेरिकाया शिकागो नगरे विश्वशान्ति सन्देशोपदिष्ट दौर्भाग्यात् अष्टादशवर्षपूर्व तस्मिन् एव दिने अमेरिकायां विश्वव्यापारकेन्द्रे आतड़क्याक्रमं द्रापादितम् अनेक आक्रमणेन सम्पूर्ण जगत् आहतम् भारत अफगानिस्तानम् संयुक्तराष्ट्रे भारतस्य स्थायि प्रतिनिधि सैयद अकबरुद्दीन प्रावोचत् यत् भारत तालिबानाफगानिस्तान प्रशासनयो मध्ये साक्षात्सम्भाषणाय संयुक्तराष्ट्रमहासचिवस्य आह्वानं समर्थयति